सममद्वपञ्चचत्वारिशत् वर्षात् अधिकवय

भवन्त भवत्यश्च सुरक्षाया उपायत्रयस्य संकल्पं स्वीकृत्य सुरक्षिता भवन्तु म्खनासिकावरकं सन्धारयन्त् दैहिकदौर्य परिपालयन्त् पाणिपादं च यथासमयं प्रक्षालयन्तु

सर्वे सूच्यौषधस्य महात्म्य विषय प्रिजागरूका स्यू इति प्रधानमन्त्री मोदी मन की बात इति आकाशवाण्या कार्यक्रमआकथयत् स इदमपि निवद्तिवान् यत् जना सूच्यौषधविषयिका भ्रान्तसूचना अस्वीकुर्यु प्रधानमंत्री अद्य उक्तवान् यत् पंचचत्वारिशत् वर्षत अधिक वयीया जना निश्ल्कतया क्ष्ट्रीयसर्वकारद्वारा प्रदत्तां सूच्यौषध सुविधां स्वीकुर्वन्त् सुविधर्त क्वि द्वारा सर्वेभ्य राज्यसर्वकारखि निशुल्कतया प्रदीयत ियं योजना आगामीमासस्य प्रथमतालिकाया सर्वेभ्य अष्टादशवर्षाधिक्ष्मि आराष्ट्रप्रिदास्यता श्रीमता मोदिना जना प्रार्थिता यत् तस्विच्यौषधस्वीकरणप्र साकं समवधानतापि स्वीकुर्वन्तु इति यत्राप्तर्वे सुरक्षिता स्थापूर् प्रधानमन्त्रिणा प्रोक्त यत् लोका इदं मन्त्रं मा विस्मर्प्रि यत् औषधमपि समवधानतापि स आशान्वित आसीतृ यत् जना अस्मातृ संकटात् सद्यः निसृता भविष्यन्तीति

राज्यप्रशासनानि अपि पूर्णतया स्वकीय कर्तव्यपथि दत्तचित्ता सन्ति यम्र ज्ञना यथाशीघ्रं अस्मात् संकटात् मुक्ता भवरू सम्बन्धित विभिन्नक्षक्षक्ष सह अस्मत्संम्पर्क चलायमान अस्ति

प्रधानमंत्री मुम्बईनगरत कोरोणा यद्रिणा डॉ शशांक जोशिना साकं सम्भाषयन् आसीत यद्रिक्त यत जना भीता न सन्त् वयं अस्मात् महारोगात् सद्य बहिर्भूता स्याम उपक्रमऽरिमन् श्रीनगरत डॉ नवीदनज़ीरच प्रोक्तं यत् समयोऽवं अत्यधिकरूपण्धर्यस्डीनताया नास्ति जना क्विलतया सुरक्षाया उपायं स्वीकुर्वन्तु वरिष्ठ चिकित्सीय परिचारिकया भगिन्या स्रखिया प्रोक्त यत् शीघ्रतया परिक्षणं सम्यक्तया स्वीकृतसहायतया प्राणहानि न्यूनीकर्तुं शक्यता ज्ञा बेंगलुरूत संभाषन्ती आसीत्

सहस्रश चिकित्साक्षर्तीप्र सहायक भ्रातरो भगिन्यश्च अस्मिन् समय खिहर्निश सद्धिता सन्ति तथ्य ब्राहनचालका या जिकित्सालयीय वाहनानि चालयन्ति

अवसरर्षिमन् श्रीमता प्रधानमन्त्रिणा दर्ध्वासिभ्य भगवत महावीर जयन्त्यावसरस्य श्भकामना प्रषिता सहद्वीतक्रिमजान इति पावनमासस्य बुद्धपूर्णिमाया अपि स्मरणं कुर्वन् सर्वेभ्य नागरिक्ष्यि वर्धापनानि प्रदत्तानि

दह्विी पूर्णपिधानम् वरिवर्धमानान् कोरोणाप्रकरणान् निरीक्ष्य दर्दलीसर्वकारणिपूर्णपिधानस्य काल मई मासस्य तृतीयदिनांकस्य प्रात पंचवादनं यावत् परिवर्धितम्

सम्प्रति सम्यक्तया चिकित्सालयधि प्राणवायो आपूर्ति समयप्त क्रियमाणा अस्ति इत्यपि तस्त्विसम्मस्त्रि प्रतिपादितम्

एकं ऑक्सीजन एक्सप्रस्त इत्याख्यं रच्चियनं वारमक्कीप्रचलन् चत्वारि प्राणवायो प्रपूरित वाहनानां वहनं करोति यस्मिन् सप्तति मट्रिक्रिटनात्मकं प्राणवायो भारं भवति

यत्र जना गृहध्य एकान्तीभूता उतो वा चिकित्सालयध्य उपचार्यमाणा सन्ति

स्वस्थतामिति सम्प्रति अपचीय त्रयाशीति दशमलव शून्य पंचमिति जाता प्रायश पंचसप्तति प्रतिशत रोगिण दशराज्यश्रि एव सन्ति

औषधस्य सर्वाधिका पञ्चत्रिंशत सहम्राधिक चतुर्लक्ष मात्रा महाराष्ट्र राज्य स्च्यौषधीकरण भारत स्निम्प्रतं यावत् चतुर्दश कोटिमितादपि अधिकजनाः कोविड संक्रमण प्रतिरोधि सूच्यौषधं प्राप्तवन्तः एषु ऊनाशीति सहस्राधिक द्वानवति लक्ष स्वास्थ्यकर्मिणः सूच्यौषधस्य प्रथमां मात्राम् अपि च षष्टि लक्षाधिकाः स्वास्थ्य कर्मिणः सूच्यौषधस्य द्वितीयां मात्रां प्राप्तवन्तः